यत् स्थानीय वस्तूनां क्रयणं महात्म गान्धिन तदीय सार्धेकशततमीं जयन्तीम् उपलक्ष्य तस्मै सर्वोतम श्रद्धाञ्जलिर्भविष्यति

जननायक जनता पार्टीति दलस्य द्ष्यन्त चौटाला उपम्ख्यमन्त्रि पदाय शपथमग्रहीत्

प्त्रीणां सम्माननेन भारतस्य नारीशक्ते तदीयोपलब्धीनां च सम्मानं भवति त्वीवं तेनोदिरितमं

प्रधानमन्त्रिणा दीपेत्सवावसरे स्थानीय वस्तुनां क्रयणाय जना विनिवेदिता तेनोक्तं यत् स्थानीय वस्त्नां क्रयणं महात्म गान्धिन तदीय सार्धैकशततमीं जयन्तीम उपलक्ष्य तस्मै सर्वोतम श्रद्धाञ्जलिर्भविष्यति लौहप्रुष सरदार पटेलं संस्मरन् श्री मोदी न्यगादीत् यत स जनान् एकस्मिन् स्त्रे बध्नात्ं वैचारिक स्तरे असहमतान् अपि जनान् स्वपक्षे विधात्ं च निप्ण आसीत् सरदार पटेलस्य मासेऽस्मिन् एकत्रिंशे दिनाङके जयन्ती वर्तते श्रीमना मोदिना उक्तं यत् ऑक्टोबर मासस्य एकत्रिंशत् दिनाड़क राष्ट्रियैकता दिवसत्वेन परिपाल्यते दिवसोऽयं देशस्य एकताया अखण्डताया स्रक्षायाश्च संरक्षणाय सन्देशं प्रददाति

प्रधानमन्त्रिणा उक्तं यत् आगामि मासस्य द्वादशे दिनाङ्के सिक्खधर्म संस्थापकस्य ग्रु नानकदेवस्य पञ्चाशदधिक पञ्चशततम प्रकाशोत्सव अखिलेऽपि विश्वे आमानयिष्यते श्रीमता मोदिना उक्तं यत् गुरुनानकदेवाय सेवाभावना सर्वोच्चस्थानं भजते स्म

राज्यपालेन सत्यदेव नारायण आर्येण असौ अद्यापराह्ने चण्डीगढे राजभवने पद गोपनीयतायै शपथं ग्राहित जननायक जनता पार्टीति दलस्य नेता दष्यन्त चौटाला उपमुख्यमन्त्रि पदाय शपथमग्रहीत दीपावली ज्योतिषां पर्व दीपावली अद्य अशेष देशे सोल्लासं समायोज्यते असताम्परि सतां विजय द्योतकं पर्वोत्तममेतद उपलक्ष्य जनाः सुख समुद्धीनां देवीं धनलक्ष्मीं श्रद्धया सम्प्जयन्ति